वार्ताया चतुर्थं चक्रं बहस्पतिवासरे अनुष्ठास्यते

स्वास्थ्यमिति चत्वारि नव दशमलवोत्तर त्रनावति मिना संहत्ता

भारतं ऑस्ट्रेलिया देशं च अन्तरा त्रि एकदिवसीय स्पर्धाश्रृंखलायाः तृतीया स्पर्धा अत्र कैनबेरा क्रीडाङ्गणे स्पर्धिष्यते इति

ह्यः नवदिल्ल्याम् कृषक संघटनैः साकं उपवेशनानंतर वार्ताक्रमे श्रीतोमरः प्रत्यपादयत् यत् प्रशासनेन कृषकाः समध्यर्थिताः यत् ते आन्दोलन समाप्य वाता विदध्यः तेन प्रोक्त यत् एतन्निर्णय कृषकाना कृषक संघटनाना वर्तते

तोमरः अवोचत् यत् उपवेशनस्य चत्थं चक्रं बृहस्पतिवासरे अनुष्ठास्यते उपवेशनेऽस्मिन् वाणिज्य मंत्री पीयूष गोयलः वाणिज्य राज्यमंत्री सोमप्रकाशश्चापि उपस्थितो आसीत् कोरोना भारतेन कोरोनासंक्रमण विरुध्य प्रवर्तिते युद्धे महत्वपूर्णा

विषाणोअन्क्रमं चत्र्विशतिदिवसेभ्यसंक्रमणस्य अभिनवप्रकरणानि प्रतिदिनं पंचाशत् सहम्रतो न्यूनानि पुष्टिंगतानि विगते अहोरात्रे प्रायएकविंशत् सहम्रमितानि कोरोनाप्रकरणानि समंकितानि यद्यपि समानसमये एव दव्यशीत्युत्तरचतु शतं संक्रमणग्रस्ता

इत्थं भारते सक्रमणग्रस्तानाम् अपेक्षया स्वस्थीभूतानो संख्या विशग्णिता वर्तते

जम्मू चुनाव जम्मू कश्मीरे जनपद् विकास परिषदः द्वितीयं चाक्रिकं मतदानं शान्तिपूर्णरीत्याः सम्पन्नम् द्वितीय चरणे जिल परिषदः त्रि चत्वारिशंत् आसनेष मतदान अनुष्ठितम् एतेष पञ्चविशंति आसनानि कश्मीर संभागे अष्टादश आसनानि च जम्मू संभागे अवर्तन्त चरणेऽस्मिन् नवति सहम्राधिक सप्त लक्ष मतदातारः मतदानार्थं योग्याः आसन् द्वितीय चरणेऽस्मिन् एकविंशत्यधिक त्रिशतं प्रत्याशिनां भाग्यनिर्णयो निर्वाचन मत पेटिकायां जातः